प्रधानमन्त्री नरेन्द्रमोदी सबलं प्रत्यपादयत् यत् नागरिकता संशोधनाधिनियम नागरिकता प्रदानार्थमस्ति न तु नागरिकता निरसनाय इति जनवरी दशमीत गौहाट्यां समायोजयिष्यमाणे खेलो इण्डिया कार्यक्रमे सप्तत्रिंशद् दलानां सार्ध षट् सहस्रं धावका प्रतिभागितां करिष्यन्ति

प्रधानमन्त्रिणा एकस्मिन् ट्वीट् सन्देश व्यलेखि यत् विधिरयं प्रतिवेशि देशानां धार्मिक रूपेण प्रताडित जनेभ्य नागरिकता प्रदानस्य अस्ति न त् कस्यचित् देशवासिनो नागरिकता निरस्तीकरणस्य प्रधानमन्त्रिणा अपरस्मिन् ट्वीट् सन्देशे सद्ग्रो जग्गीवासुदेवस्य वीडियोलिंक इति दृश्य श्रव्यांकन सम्पृक्तिश्चापि सम्प्रेषिता प्रधानमन्त्रिणा भणितं यदिदं दृश्यांकनम् अस्माकम् ऐतिहासिक सन्दर्भान् भ्रातृत्वं संस्कृतिं च उत्कृष्टतया सन्दर्शयति

भाजपा समिति भारतीय जनता पार्टीति दलेन राजस्थानस्य कोटायां नवजात शिश्नां मृत्यु विषये संज्ञानार्थं समितिरेका संरचिता

राष्ट्रिय राजधान्याम व्यापारि सम्मेलन कार्यक्रमं सम्बोधयन् असौ प्रतिभागि जनान् अध्यार्थयत् यत् ते दिल्ल्यां भाजपा प्रशासनं रचयित् भाजपाया समर्थनं कुर्यू येन तेषां हितसंरक्षणं सम्भवेत्